भारतीयसेनाभिः पाकिस्तानाधिकृते कश्मीर त्रीणि आतंकि शिविराणि प्रणष्टानि दश पाकिस्तानीय सैनिकाश्च व्यापादिताः भारत दक्षिणा फ्रीका दलयोर्मध्ये रांचीनगरे अनुवर्तमानायाः क्रिकेट् निकष स्पर्धायाः अन्तिमे चरणे भारतदलं विरुद्धय दक्षिणाफ्रीकादलं स्वीय प्रथम प्रर्याये द्वितीय दिनस्य क्रीडा समारप्स्यते

महाराष्ट्रे अष्टाशीत्यधिक द्वि शतम् आसनानां कृते पञ्च शताधिक द्वि शतं महिला प्रत्याशिनः समेत्य सप्त त्रिंशदत्तर द्विशताधिक त्रि सहसं प्रत्याशिनः स्पर्धन्ते

आहत्य चत्रशताधिक सहस्रं निर्दलीय प्रत्याशिनः अपि नैर्वाचनिक स्पर्धांगणे विद्यन्ते निष्पक्षरीत्या मतदानान्ष्ठानार्थं व्यापक सुरक्षा प्रबंधाः विहिताः सन्ति हरियाणा राज्ये नवति विधानसभा सनानां कते चतरधिकशतं महिला प्रत्याशिनः समेत्य ऊनसप्तत्यधिकैकशतोत्तर सहस्रा जनाः नैर्वाचनिक स्पर्धांगणे विद्यन्ते मुख्यस्पर्धा भारतीय जनता पार्टी कांप्रेस इंण्डियन नेशनल लोकदल दलाना मध्ये वर्तते

प्रायः त्यशीत्यधिकैक कोटि मतदातारः स्वीय मताधिकारान् प्रयोक्ष्यन्ति शान्तिपूर्णरीत्या मतदानायोजनाथं सर्वाः सज्जताः विहिताः सन्ति उभयोः राज्ययोः मतगणना अस्य मासस्य चत्विंश दिवसे भविष्यति उपनिर्वाचनम् सप्तदशराज्येष् एकपञ्चाशत् विधानसभासनानां कृते अथ च लोकसभायाः आसनद्रयाय उपनिर्वाचनानि अनुष्ठीयन्ते बिहारस्य समस्तीपूर लोकसभासनाय अथ च महाराष्ट्रस्य सतारा लोकसभानाय मतदानं समायोज्यते मतगणना ब्हस्पतिवासरे सम्पत्स्यते जम्मू कश्मीरम सेना भारतीयसेनाभिः पाकिस्तानाधिकृते कश्मीर त्रीणि आतंकि शिविराणि प्रणष्टानि दश पाकिस्तानीय सैनिकाश्च व्यापादिताः पाकिस्तानद्वारा विहितस्य अकारणमेव गोलिका वर्षणस्य प्रत्यृत्तरे भारतीय सैनिकैः आक्रमणमिदं विहितमस्ति विस्तृत विवरणं सम्प्रति प्रतीक्षते रक्षामन्त्री रक्षामन्त्री राजनाथसिंहः अद्य लद्दाखं प्रयाति सः तत्र नव निर्मितस्य कर्नल चेवांग रिन्वेन सेतोः उद्घाटन कार्यक्रमे समुपस्थास्यति ध्येयमस्ति यत् लद्दाख क्षेत्रात् अप्र भागे पञ्चाशद्तर षट् शताधिक चत्र्दश सहस्रं फीट मिते उच्चस्तरीय क्षेत्रे विनिर्मितस्य सेतोः निर्माणकार्यं बीआर ओ इति सीम मार्ग संघटन द्वारा विहितमस्ति

आत्मसमर्पणं विहितेष चतृर्ष माओवादिष निग्रहणार्थं प्रस्कारस्य घोषणा विहितासीत् आरक्षिभिः सुचितं यत् एते माओवादिनः सुरक्षाबलानि अभिलक्ष्य विहिताक्रमण घटनासु संलिप्ताः आसन्